सर्वोज्ञन्यायालयःक्षतिपूर्तिः सर्वोच्च न्यायालयस्य आदेशम् अनुसृत्य उत्तरप्रदेश शासनेन गतरात्रौ उन्नाव दुष्कर्म पीडितायै पश्चविंशति लक्ष रूप्यकात्मको राशिः प्रदत्तः उत्तरप्रदेश राजधान्यां लखनऊ नगर्यां गतनिशीथे लखनऊ जनपद दण्डाधिकारिणा कौशल राज शर्मणा पीडितायाः मात्रे पश्चविंशति लक्ष रूप्यकात्मकं धनादेशपत्रमेकं समर्पितम् द्ष्कर्म पीडिता लखनऊ स्थे किंग् जॉर्ज् चिकित्सकीय महाविद्यालये साम्प्रतम् उपचर्यमाणा विद्यते पीडितायाः परिवारेण समं मेलनानन्तरं श्रीमता शर्मणा निगदितं यत् पीडितायाः तदीयाधिक्तश्व स्वास्थ्यस्थितिः भद्रायते तत्रान्तरे उन्नाव दुष्कर्म प्रसंगे पञ्जीकृतानि पञ्च प्रकरणानि सर्वोच्च न्यायालयेन दिल्लीन्यायालयं प्रति स्थानान्तरितानि शीर्ष न्यायालयस्य खण्डपीठेन प्रसंगेऽस्मिन् वादश्रवणाय निर्णयार्थश्व पश्व चत्वारिंशत् दिवसाः एव प्रदत्ताः अस्यां द्र्घटनायां पीडिता तदधिवक्ता च क्षतिग्रस्तौ परं तत्र पीडिताया सम्बन्धि द्वयं मृत्युम्पगतम् निर्णयोऽयं प्रधान न्यायाधीशेन रंजन गोगोई वर्यस्याध्यक्षयुतेन खण्डपीठेन ह्यः श्रावित अपरत्र दुष्कर्मे संलिप्त उत्तरप्रदेशस्य भाजपा विधायक कुलदीप सेंगर भाजपादलेन निष्कासित प्रकरणे अन्येऽपि उत्तरप्रदेशस्य त्रय आरक्षिण कार्यावधौ कृतशैथिल्य कारणाय निलम्बिता इमे समेऽपि पीडिताया सुरक्षायै नियुक्ता आसन् संसद संसदा ऊनविंशाधिक द्विसह्न्वतम वर्षीयं पोक्सो इति बाल यौनापराध संरक्षण विधेयकं धनहीनता संहिता विधेयकं ऋणशोधनाक्षमता विधेयकं च अभ्युपगतमु ऋणशोधनाक्षमता धनहीनतासंहिता विधेयके गतवासरे लोकसभया अभ्य्पगते इतः प्राक् एते उभेऽपि विधेयके राज्यसभया अभ्यूपगते आस्ताम् अपरतः बाल यौनापराध संरक्षण विधेयकमपि राज्यसभया प्रागेव अभ्य्पगतमासीत् ह्यः एतत् लोकसभया अपि अभ्य्पगतम्